सन् र्भेऽस्मिन् म्ख्य न्यायालाधीशस्य न्यायमूर्त्ते श्रीरञ्जन गोगोई वर्यस्य अध्यक्षता य्तेन पञ्च स स्यात्मकेन सांवैधानिक पीठेन सर्व सम्मत्या पा ोन प्रहल त्रय परिमिता अयोध्या विवा भुमि श्रीरामलला न्यासाय समर्पितः न्यासश्चायं केन्द्र प्रशासनेन यथाशीघ्रं तत्र श्रीराममन्धिर निर्माणार्थं संघटयिष्यते इति न्यायालयेन समाधिष्टम् सहैव न्यायपीठं व्यवास्थापयद् यद् अयोध्याया प्रम्ख क्षेत्र गता काचित् पञ्च प्रहल मितो भूखण्ड प्रशासनेन मस्जि स्य निर्माणाय स्न्नी वक्फ मण्डलाय सद्य समर्पणीय

पिवसे अयोध्या निर्णयमन्सृत्य गतसायं राष्ट्रं सम्बोधयन् श्रीमोधी न्यगाधीत् यत् समाजस्य प्रत्येकं सम् ायेन न्यायालयस्य निर्णयोऽयं हृ ा अभिनन् त चक्रवात प्रचण्ड ब्लब्ल चक्रवात गतनिशीथे पश्चिम बंगालस्थस्य सागर द्वीपस्य बांग्ला शस्थस्य खेप्पाड़ा क्षेत्रस्य च मध्ये अवतीर्ण

अनेन चण्ड वातेन हय पश्चिम बंगालस्य तटीयक्षेत्रे प्रबलो वृष्टिपात साक्षात्कृत नैके वृक्षा उत्खाता कोलकातायाम् ओडिशायां च ऐकैको जन मृत्युमुपगत सूच्यते